अष्टादशोत्तर द्वि सहस्र तम वर्षस्य अन्सूचित जाति जनजाति संशोधन विधेयकस्य वैधता शीर्षन्यायालयेन यथावस्थं सुरक्षिता केन्द्रीय स्वास्थ्यमन्त्री डॉ हर्षवर्धन ब्रते यत् नोवल कोरोना विषाणो संक्रमण सम्मुखीकर्त् राष्ट्र सर्वतोभावेन सन्नद्वमस्ति दिल्ली विधानसभा निर्वाचनेभ्य मतगणतना श्वो विधास्यते निखिलेऽपि देशे अद्य प्रभृति समारब्धम् एक भारतं श्रेष्ठं भारतम् इत्याख्यम् अभियानम् शीर्षन्यायालय शीर्षन्यायालयेन आदिष्ट यत् सीएए इति नागरिकता संशोधन विधिं विरूद्वय दिल्या शाहीन बागे प्रदर्शनं समाचरन्त प्रदर्शनकारिण मार्गपिधानपूर्वकं जनसामान्येभ्य काठिन्यं नैव उपपादयित् शक्नुवन्ति अस्मिन् सन्दर्भे पाञ्जीकृत याचिकामधिकृत्य वादश्रवणावसरे न्यायाधीशयो एस् के कौल के एम् जोसफ वर्ययो खण्डपीठेन दिल्लीप्रशासनं दिल्यारक्षिबलं च परिपृष्टम् शीर्षन्यायालये पञ्जीकृत याचिकायाम् अस्यां प्रदर्शनस्थलं प्रदर्शनकारि मक्तं विधात् अभियाचितम् आसीत् शीर्षन्यायालय अष्टादशोत्तर द्वि सहस्र तम वर्षस्य अनुसूचित जाति जनजाति संशोधन विधेयकस्य वैधता शीर्षन्यायालयेन यथावस्थं स्रक्षिता न्यायाधीशस्य अरूणमिश्रा वर्यस्य अध्यक्षताय्तं खण्डपीठमद्य उक्तप्रकरणे तर्कवादश्रवणं समाचरति स्म लोकसभा सामाजिक न्याय अधिकारिता मन्त्री थावरचन्दगहलोतः अद्य लोकसभायां पदोन्नतौ आरक्षण विषये शीर्षन्यायालयस्य निर्णयमभिलक्ष्य स्वीय वक्तव्यं प्रकटितवान्

हर्षवर्धन केन्द्रीय स्वास्थ्यमन्त्री डॉ हर्षवर्धन ब्रूते यत् नोवल कोरोना विषाणो संक्रमणं सम्मुखीकर्त् राष्ट्रं सर्वतोभावेन सन्नद्वमस्ति प्रकरणमभिलक्ष्य लोकसभायां सम्भाषणकाले स्वास्थ्यमन्त्री सर्वमिदं प्राकाशयत् अमुना एतदपि सूचितं यत् स्थिति निरीक्षितुं तन्मन्त्रालयेन पृथगेक विशिष्ट समूह प्रतिष्ठापितोऽस्ति तदीय मन्त्रालयेन स्वयं स्थितौ दृष्टि सन्धार्यते एवं स्वास्थ्यमन्त्रालय दृश्य श्रव्य सम्पर्क माध्यमेन राज्यै सार्धं सम्पर्क संसाध्य सन्दर्भे स्थितिं समीक्षते शीर्षन्यायालय शबरीमला शीर्षन्यायालये शबरीमला मन्दिर प्रकरणे तर्कवादश्रवणं कुर्वता पञ्च न्यायाधीशयुतेन खण्डपीठेन कथितं यत् उक्त प्रकरणमभिलक्ष्य विस्तृत वादश्रवणार्थं तत्खण्डपीठं प्रकरणमिदं बृहत्खण्डपीठं प्रति प्रेषयित्ं अर्हति न्यायाधीश प्रमुखस्य एस् ए बोबड़े वर्यस्य अध्यक्षतायां सुसम्पन्ने वादश्रवणावसरे एतत् सुनिश्चितम् यत् संविधान विश्वासयो अन्तर्गतं धार्मिक स्वतन्त्रता विषयकानां प्रकाशमागतानां सप्तप्रश्नानां समाधानार्थं प्रकरणमिदं नव खण्डयुतेभ्य न्यायाधीशेभ्य प्रेषयिष्यते चीनदेश कोरोना विषाणो दुष्प्रभावितस्य चीनस्य यथाशक्ति साहाय्य प्रदानपरे प्रधानमन्त्रिण नोन्द्रमोदिन प्रस्तावे चीन देशेन स्वीयाभार प्रकटित

एतदर्थं राजनधान्यां एकविंशति मतगणना केन्द्राणि प्रतिष्ठापितानि सन्ति आकाशवाण्या सार्धं संवाद प्रसंगे प्रमुखो निर्वाचनाधिकारी डॉ रणबीर सिंह न्यगादीद यत् मतगणनायै सर्वा अपि आवश्यका सज्जता प्रपूरिता

सूचना प्रसारण मन्त्रालयेन समायोज्यमानम् अभियानमिदं अस्य यास्य अष्टाविशं दिनांकं यावत् प्रवर्तयिष्यते